केन्द्र प्रशासनं राज्यप्रशासनानि आवश्यकनियमोलंघनकर्तृभ्य कठोरतया व्यवहर्त् निर्दिष्टयत् प्रधानमन्त्रिणा श्रीमोदिना सञचर संस्थानानि विनिवेदितानि यत् ते अस्यां स्थितौ सकारात्मकं वार्ता प्रसारयेष् जम्मूकश्मीरस्य क्पवाडा जनपदे स्रक्षाबलै बृहन्मात्रायां आय्धास्त्राणि विस्फोटकानि च ग़हीतानि

केन्द्रप्रशासनं राज्यप्रशासनानि निर्दिष्टयत् यत् कोरोना संक्रमणं अपाकर्त् दृढतया नियमानां अनुपालनाय कार्याणि आचरन्त् एवञ्च नियमोल्लघन कृर्तभ्य कठोरतया व्यवहरन्त् केन्द्रप्रशासनेन प्रागेव प्रभावितेष् पञ्चसप्ततिजनपदेष् अत्यावश्यकसेवा विहाय सर्वविध रूपेण पिधानम् अभियाचितम् आसीत् एतेष् अत्यधिकस्थानेष् रेलयानसेवा मेट्रोयानसेवाश्च सर्वतोदृशा निरस्तीकृता सन्ति प्रधानमन्त्री मीडिया प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना कोविड नवदश इति संक्रमणम् आलक्ष्य अद्य देशस्य प्रतिष्ठित सञ्चार तन्त्रै साकं दृश्य श्रव्यमाध्यमेव संवाद विहित प्रधानमन्त्रिणा श्रीमोदिन कोरोना संक्रमण प्रसारं अवरोद्धं आवश्यकोपायानां प्रचार प्रसाराय सञ्चार संस्थानानि विनिवेदितानि तेन प्रोक्तं सकारात्मक वार्तामाध्यमेन जनै सह सम्पर्क संस्थापनीय प्रधानमन्त्रिणा साकं अस्मिन् संवादक्रमे सूचनाप्रसारणमन्त्री श्रीप्रकाशजावडेकरं समेत्य नैके उच्चस्तरीयाधिकारिण उपस्थिता आसन्

प्रधानमन्त्रिणा प्रोक्तं यत कृतजराष्ट्र सर्वदैव एतेषां स्वातन्त्र्यवीराणां सर्वोच्च बलिदानं स्मरिष्यति

श्रीमोदी प्रतिपादयत यत डॉ लोहियावर्यस्य कार्याणि विचाराश्च सर्वदैव अस्मान् संप्रेरियन्ति कोरोना मामले देशे कोविड नवदश इति संक्रमणेन साम्प्रतं यावत् पञ्चदशाधिक चत्रशतं जना संक्रमिता सूच्यन्ते आहत्य संक्रमितेष् उपचार्यमाणा त्रयोविंशति जना रोगम्क्ता सत्जाता

तथैव आवश्यकतान्गुणं राज्यस्य परिवहनसेवा अपि बाधिता प्रशासनेन चत्वारिंशत कोटिरूप्यकाणां अतिरिक्त साहाय्यराशि प्रख्यापित येन हि आवश्यकोपाया विधीयन्ते